विधास्य उच्चतम न्यायालयेन सीबीआई विभागस्य उन्नाव दुष्कर्म प्रकरणे दृष्कर्म पीडितायाः तस्याः अधिवक्त् मार्गीय द्र्घटनाया अन्वीक्षणार्थं सप्ताहदवयस्य अतिरिक्तः समय प्रदत्तः शीर्ष न्यायालयेन तहलका पत्रिका संस्थापकस्य तरुण तेजपालस्य याचिका निराकता

सर्वाणि शिक्षा संस्थानानि प्नरुदघाटितानि सन्ति व्यापारिक प्रतिष्ठानानि सुचारूतया कार्यमाचरन्ति रामबन जनपदे बनिहाल उप सम्भागम अतिरिच्य सर्वेष् स्थलेष् प्राथमिक माध्यमिक उच्चतर माध्यमिक विद्यालया अद्य पुनरुद्घाटिता कश्मीरोपत्यकासु प्रतिबन्धा भवन्त्यपि विद्यालया प्नरुद्घाटिता आधिकारिक स्त्रोतांसि सुचयन्ति यत श्रीनगर नगरस्य नवत्युत्तर शतेष् प्राथमिक विद्यालयेष् सर्वे आवश्यक स्रक्षा प्रबन्धा प्रकल्पिता सन्ति अअ्रान्तरे अखिल जम्मू संभागे संचार जंगम द्रभाष सेवा अन्तर्जालीय सेवाश्च बाधिता सन्ति जम्मू संभागीय आयुक्त संजीव वर्मान्सारि शीघ्रमेव एता सेवा संचालयिष्यन्ति आरक्षि महानिरीक्षकेण म्केश सिंहेन संभाग आयुक्तेन च जना अध्यर्थिता यत्ते निराधार भ्रमोत्पादक अलीक वार्तासु नैव अवध्येय प्रधानमन्त्री प्रधानमन्त्री श्रीनरेन्द्रमोदी मासस्यास्य दवाविंशतिदिनांकत षडविंशति दिनांक पर्यन्तं राष्ट्र त्रयाणां फ्रांस संयुक्त अरब अमीरात बहराइन यात्रां विधास्यति तत्र श्रीमोदी दवि पाक्षिक क्षेत्रीय पारस्परिक हित सम्बदध अन्ताराष्ट्रिय प्रकरणानि सम्भाषिष्यति

थावरचन्द गहलोत ऑस्ट्रेलियाया एकेन प्रतिनिधिमण्डलेनादय नवदिल्ल्यां सामाजिक न्याय अधिकारि मन्त्रिणा थावर चन्दगहलोतन मेलनं व्यदधात्

प्रतिनिधि मण्डले ऑस्ट्रेलिया भारत संस्थान निदेशक मुख्य कार्यकारी अधिकारी प्रो जेफरी अन्य सदस्यैश्च समेकित विकास पाठ्यक्रम संय्क्त नेतृत्व विकास कार्यक्रमे च चर्चा विहिता श्री गहलोतेन प्रोक्तं यत प्रदेश दवयानां प्रशासनं दिव्यांगजनेभ्य कल्याणाय तेषां हित संरक्षणाय च उपाया विधास्यत

अद्य विलनियसे भारत लिथ्आनिया व्यापार मंचं सम्बोधयन श्री नायड़ प्रोक्तवान यत लिथ्आनिया भारतस्य मेक इन इंडिया प्रारंभस्य स्वागतं आचरति उपराष्ट्रपति लिथुआनिया लातविया स्टोनिया देशानां पंच दिवसीय यात्रारतो वर्तते उन्नाव उच्चतम न्यायालयेन उत्तर प्रदेशे विहित मार्गीय दुर्घटना प्रकरणस्य अन्वीक्षणं प्रप्रणार्थ केन्द्रियान्वीक्षण विभागाय सप्ताह दवयस्य समय प्रदत्तः घटनायामस्यां उन्नाव दृष्कर्म पीडिता तया अधिवक्ता च गंभीर रूपेण आहतौ स्तः पीठेन उत्तरप्रदेश प्रशासनाय गंभीर रूपेण आहत अधिवक्त्रे पंच लक्ष रूप्यक साहाय्य राशे घोषणापि विहितास्ति